असमप्रदेशो पश्चिम बंगाले च विधानसभा निर्वाचनानां द्वितीय तृतीय चरणयोः कृते विभिन्नानां राजनैतिक दलानां प्रचाराभियानानि सम्प्रति तीव्रतां गतानि

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड़कल्पं स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकद्रतां परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त औषधम् अपि सावधानता अपि

प्रधानमन्त्री देशवासिनः आहतवान् यत् ते इमं मन्त्रं पालयित्ं सततं कटिबद्धाः भवेय़ः तेन कोवि मसूरणम अवश्यं स्वीकर्तम तद योग्याः जनाः सबलम आहताः क्री प्रेस् महिला जनानाम् उपलब्धीः भूरिशः प्रशंसन् श्रीमोदी अन्ताराष्ट्रिय क्रिकेट स्पर्धास् दश सहस्र धावनांकान् अर्जितवर्ता मिताली राजं सविशेषं वर्धापितवान्

केन्द्रीय स्वास्थ्य मन्त्रालयः संसूचितवान् यत् एभ्यः सप्तभ्यः प्रदेशेभ्यः सार्ध एकाशीतिः प्रतिशतं प्रकरणानि संसूचितानि निर्वाचनप्रचार असमप्रदेशे पश्चिम बंगाले च विधानसभा निर्वाचनानां द्वितीय तृतीय चरणयोः कृते विभिन्नानां राजनैतिक दलानां प्रचाराभियानानि सम्प्रति तीव्रतां गतानि सन्ति तत्र द्वितीय चरणे मतदानं अप्रैलमासस्य प्रथमदिनांके भविष्यति एवमेव केरले तमिलनार्थी पुद्दुचेयां च एक चरणात्मक निर्वाचनाय घन प्रचाराः प्रवर्तन्ते

प्रतिवर्ष मार्च मासे समागन्त्कः एषः महोत्सवः न केवलं जनेष् अपि त् पश्ष् वनस्पतिष् च नव जीवनं संचारयति अनेन पर्वणा एव ऋत्राज वसन्तस्य श्भारम्भः अपि संजायते अस्य पूर्व सन्ध्यायां होलिका दहनं भवति हिन्द् जनानाम् अन्य पर्वाणि इव इदम् अपि पर्व असत्स् सतां विजयं संदिशति